अमुना अत्रैव भारतीयक्रीडनकनिर्मातृभ्य समाकारितं यत् निर्मातार पर्यावरणस्य बालमनोविज्ञानस्य च अनुकूलं क्रीडनकानि निर्मापयेयु इति

सर्वत्रापिनैर्वाचनिकक्षेत्रेषु आचारसंहिता प्रवर्तिता

असौ अद्य भारत क्रीडनकमेलाम् दृश्य श्रव्यप्रणाल्या उद्घाटयन्प्रतिपादितवान्यत् मेलेयम् आत्मनिर्भर भारतस्य निर्माणे अपि च देशस्य पुरातनपरम्पराया आधारस्थापन दिशि महत्वपूर्ण पदक्षेप अस्ति अत्रावसरे श्री मोदिना एतदपि उक्तं यत् भारतस्य क्रीडनकानि अन्येषाम् अपेक्षा अल्पमूल्ययुतानि पर्यावरणानुकूलोत्पादैः च विनिर्मितानि सन्ति अत्रैव भारतीयक्रीडननिर्मातृभ्य समाकारितं यत् निर्मातार पर्यावरणस्य बालमनोविज्ञानस्य च अनुकूलं क्रीडनकानि निर्मापयेयु इति तेनोक्तं यत् क्रीडनकमेला न केवलं व्यापारस्य आर्थिकगतिविधे च आधारं संस्थापयति अपितु देशस्य प्राचीनकालिक क्रीडनकसम्बद्ध संस्कृते आधारप्रदानस्य आयोजनमपि वर्तते श्रीमोदिना अवसरेऽस्मिन् प्रतिपादितं यत् देशवासिभि अत्र प्रसंगे सिंधु घाटी अपि च मोहनजोदड़ो सभ्यताया क्रीडनकानामुपरि अनुसन्धानं कृतमस्ति क्रीडनकानि शिशुनाम् अधिगमप्रक्रियायां महत्वपूर्णां भूमिकां निर्वहन्तिइत्यपि प्रधानमन्त्रिणा प्रोक्तम् तेन विज्ञापितं यत् ग्रन्थेषु भगवत श्री रामस्य नैकविध क्रीडनकानाम् उल्लेख प्राप्यते

सूचनेयं ह्यो मुख्य निर्वाचन अधिकारिणा सुनील अरोड़ा महोदयेन नवदिल्ल्यां प्रदत्ता कोविड राष्टिय अपडेट केन्द्रीयस्वास्थ्यमन्त्रालयेन प्रोक्तं यत् देशे लाभार्थिभ्य अद्यावधि द्विचत्वारिंशत् लक्षाधिकैककोटितोऽप्यधिकानि सूच्यौषधानि प्रदत्तानि विगतचतुर्विशंतिहोरासु उनसप्ततिसहस्रोत्तर सप्तलक्षाधिकेभ्य स्वास्थ्यविभागसम्बद्धकार्यकर्तभ्यः इदं प्रदत्तम् अत्रान्तरे कोरोणास्वस्थतामितिः प्रवर्ध्य प्रतिशतं सप्तनंवति दशमलव एकचतुर्मिता संजातास्ति विगते अहोरात्रावधौ द्वादशसहस्रंजना स्वास्थ्यलाभं प्राप्तवन्त अपि च षोडशसहस्राधिकानि अभिनवनूतनानि कोरोना प्रकराणि समक्षमागतानि

अपि च एतत्सम्बद्धं समुचितव्यवहारं समाचरेयुः अमुना अद्य समीक्षोपवेशनावसरे कोरोना संक्रमणविस्तारम् न्यूनीकर्तुं नैके परामर्शा राज्येभ्य प्रदत्ता गृहसचिव राज्यानि च ग्रहसचिवेन अजय भल्लावर्येण राज्येभ्य केन्द्रशासितप्रदेशेभ्यश्च च प्रोक्तं यत् कोविड महामार्या दूरीकरणार्थं ते सावहितं कठोरनिर्देशानां पालनं कुर्यु इति अमुना मार्चमासस्य अम्तियं दिनं यावत् कोविड महामार्याः दिशानिर्देशानां अनुपालनाज्ञायाः अग्रेसारणानन्तरं राज्येभ्य केन्द्रशासितप्रदेशेभ्यश्च पत्रं लिखितम्

मासिकस्य श्रव्य कार्यक्रमस्य इदं चतुस्सप्रति तमं संस्करणं भविष्यति आकाशवाण्या दूरदर्शनस्य च सर्वाभि प्रवाहिनीभि अस्य प्रसारणं भविष्यति

अपि च सिख धर्मस्योपरि संत रविदासस्य मुख्यप्रभाव दरीदृश्यते एतस्य चत्वारिंशत् कविता सिखमर्धस्य अदिग्रन्थे सम्मिलितास्सन्ति भारत बांग्लादेश वार्ता भारतबांग्लादेशाभ्यां सुरक्षासीमासम्बद्धप्रकरणेषु परस्परसहयोगं इतोऽप्यधिकं विस्तारयितुं अपि च सुदृढकर्तुं पुनर्स्वप्रतिबद्धता स्वीकृता

एतद्धि बांग्लादेशमुक्तियुद्धस्य पंचाशत् वर्षस्य अपि च राजनैतिकसम्बन्धस्थापनस्य मुजीव बारशो इत्यस्य पृष्ठभूमे समुपलक्ष्ये समायोजितमासीत्